अन्तर्जालीय माध्यमर्म स्वीय औद्वाटनिक सम्भाषण ति भारतीय ं गौरवं वैश्विकपटल स्थिपयितुं युवान अभ्यर्पिता

प्रत्यवाप्तमिति चत्वारि एकम् दशमलवोत्तर षण्णवति प्रतिशतं यावत् विवर्धिता

उपवर्धामविमन् मन्त्रिमण्डलीयसचिव प्रधानमन्त्रिण प्रधानसचिव स्वास्थ्य सचिव अन्या शीर्षाधिकारिण उपस्थिता आसन्

राष्ट्रपति एतत्क्रमिकं षोडश प्रवासि भारतीय दिवस समारोह सम्बोधयन्नासीत् प्रधानमन्त्री नरद्विमोदी अद्य षोडश प्रवासि भारतीय दिवस समारोहं दृश्य श्रव्य परान्तर्जालीय माध्यमर्त समुद्घाटयत्

तक वियाहत यत् भारत विनिर्मितोत्पादेः समाधनैश्च अश्व विश्वं लाभान्वितं भविता श्रीमोदीना युवान प्रौद्यौगिकीय माध्यमप्त भारतीयसंस्कृति गौरवञ्च वैश्विकपटलप्रिपयितुं समभ्यर्पिता

तदीय योगदानं दर्जस्वास्थ्यसुविधा सुदृढीकतुँ प्रधानमन्त्री साहाय्य कोशर्त्री अवलोकयितुं शक्यता प्रधानमन्त्री अवादीत् यत् भारत अद्य भ्रष्टाचार उन्मलयित् प्रौद्यौगिकीय प्रयोगं विदधाति अपि च लाभार्थिना वित्ताकोशाह् कोट्यधिकानि रूप्यकाणि सम्प्रधिप्तानि सन्ति प्रधानमन्त्री स्पष्ट्यकरोत् यत् राष्ट्रं यदा आत्मनिर्भरभारतम् इत्यभियानं सबलीकतुं प्रयासरतं आसीत् तदा प्रवासिभारतीयै एतदभियानं प्रवर्धयितुं महत्तवपूर्णभूमिका निभालिता

प्रकरणीमन् महाराष्ट्रस्य स्वास्थ्यमन्त्रिणा डॉ राजम्ब्रिटोपणशोक व्यक्त एवञ्च तर्म उच्चस्तरीय निरीक्षणाय समादिष्टम् राष्ट्रपतिना उप राष्ट्रपतिना प्रधानमन्त्रिणा च दुर्घटनायां शोक अभिव्यक्त

प्रधानमनित्रणो मासिक कार्यक्रमस्य इद त्रिसप्ततितमं संस्करणं भविष्यति

एकस्मिन संयुक्त वक्तव्य ट्विविटर समवाया स्पष्टीकृतं यत ट्रम्प इत्यस्य अचिरम विलिखित लखि सूक्ष्मतया अवलोक्य अयं निर्णयो विहित

ध्यानास्पदं अस्ति यत् नवनिर्वाचित राष्ट्रपताओ बाइड्री इत्यस्य औपचारिक घोषणाया प्राक् शताधिक ट्रम्पप्रशंसकै तत्रत्य कैपिटल भवन हिंस घटना द्रापादिता आसन्